मोदि ट्रम्प मेलनम प्रधानमन्त्री श्रीनरेन्द्र मोदी संयुक्त राष्ट्र महाधिवेशनस्य पार्श्वभागे अमेरिकीय राष्ट्रपतिं डॉनल्ड ट्रम्पम् अमिलत् द्विपाक्षिक सन्धींश्चाधिकृत्य चर्चा व्यदधात् राष्ट्रपतिष्ट्रम्प प्रावोचत् यत्तदीयो देश शीघ्रमेव भारतेन सार्धं स्वीयं व्यापारिक सम्बन्धं द्रढयिष्यति पश्चाद् न्यूयॉर्के वार्ताहरै सम्भाषणे ट्रम्प व्याहरत् यद् देश द्वयं पारस्परिक ं व्यापार सम्बन्धमधिकृत्य ग्णात्मक दृष्ट्या अग्रेसरति अपरत श्रीमोदिना सम्दीरितं यद् ह्यूस्टने ट्रम्पस्य उपस्थितौ पेट्रानेट इति भारतीय समवायेन हस्ताक्षरितः सार्ध द्व्यर्ब्द डॉलर मुद्रात्मक व्यापार सन्धि तस्य कृते महतो हर्षस्य विषयो विद्यते

मेलनावधौ नेतृभिरेतै विकसद देशानां स्थिर विकास लक्ष्याणि अधिकृत्य पारस्परिक सहयोगार्थ विस्तृत चर्चा व्यधायि श्रीमोदी अवदत् यत् यद् भारतं जलवाय् परिवर्तन जन्यानि प्रभाव जातानि संम्खीकर्त् समाधातं च बद्धपरिकरं विद्यते तेन सन्दर्भेडस्मिन् इतरेषां प्रशान्त द्वीपीय देशानां सहयोगाय भारतस्य सदा सज्जता प्रतिज्ञाता अवसरेड़स्मिन् प्रधानमन्त्रिणा सबका साथ सबका विकास इति स्वीय प्राशासकीय मुल नीते अन्तर्गतं प्रशान्त दवीपीय क्षेत्रे विभिन्नानां विकास परियोजनानां प्रवर्तनार्थ विंशति लक्षाधिकैक कोटि अमेरिकीय डॉलर म्द्राणां साहाय्य राशि प्रदानं सम्द्घोषितम्